अद्य सूच्यौषध उत्सवस्य दवितीय दिवस अस्ति सूच्यौषध उत्सवस्य दवितीये दिने अद्य सम्पूर्णे देशे चत्वारिंशत् लक्षादपि अधिकेभ्यो जनेभ्यो सूच्यौषधं प्रदत्तम्

देशस्य विभिन्नेष् क्षेत्रेष् अद्य नैका उत्सवा सन्ति

एतदर्थ निवेद्यते यत् असावधानताया आचरणं मा व्यवहरन्त् सममेव पञ्चचत्वारिंशत् वर्षात् अधिकै सर्वै जनै सूच्यौषधं स्वीकरणीयम् भवन्त भवत्य च स्रक्षाया उपायत्रयस्य संकल्पं स्वीकृत्य स्रक्षिता भवन्त् मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त् कोविड अद्यतनम् स्वास्थ्यमन्त्रालयान्सारेण ह्य षड्रत्रिंशत् अधिक सप्तशतोत्तर एकषष्टि सहस्रोत्तर एकलक्षमिता जना नवीनकोरोणाग्रस्ता इति संगणिता स्वस्थतामिति च अपचीय नवाशीति दशमलव एकपंचाशत् प्रतिशतम् अस्ति आराष्ट्रे सक्रियप्रकरणानां संख्या चत्ः षष्टि सहस्र अधिक दवादशलक्षमितम् अस्ति सुच्यौषधम् अद्य सूच्योषध उत्सवस्य द्वितीय दिवस अस्ति प्रधानमन्त्रिण अप्रैलमासस्य एकादश दिनांकत चत्र्दशदिनांक पर्यन्तं सूच्यौषधोत्सवस्य आहवानस्य अनन्तरं सूच्यौषध प्रदानस्य कार्यक्रमे तीव्रता द्रष्ट् शक्यते सूच्योषध उत्सवस्य द्वितीये दिने अद्य सम्पूर्णे देशे चत्वारिंशत् लक्षादपि अधिकेभ्यो जनेभ्यो सूच्यौषधं प्रदत्तम् विश्वस्य बृहत्तमस्य द्र्ततमस्य सूच्यौषधाभियानस्य सप्ताशीतितमे दिने देशे सूच्यौषधा केन्द्राणा संख्यायाम् अपि वृद्धि जाता इदानीं देशे एकसप्तति सहस्र सुच्यौषधकेन्द्राणि सन्ति अखिले देशे साम्प्रतं यावत पञ्चाशीत्यधिक दशकोटिमितेभ्यो अपि अधिका जना सुच्यौषधं प्राप्तवन्त स्वास्थ्य मन्त्रालयेन संसूचितं यत् साम्प्रतं यावत् पञ्चत्वारिंशत्वर्षात् अधिकवर्षस्य षष्टिलक्षाधिक सप्तकोटि जना एतादृशा सन्ति ये सूच्यौषधस्य प्रथमां मात्रां प्राप्तवन्त तत्रैव अस्य वयोवर्गस्य विंशत् लक्ष जना एतादृशा सन्ति ये सूच्यौषधस्य दवे अपि मात्रां प्राप्तवन्त फ्रांस विदेशमन्त्री फ्रांसदेशस्य विदेश मन्त्री ज्यां वेस ली द्वियां भारतस्य पञ्चदिवसात्मक यात्रार्थं गतरात्रौ दिल्लीम् आगत स अदय भारतस्य विदेशमन्त्रिणा एस जयशंकरेण सह दविपक्षीयेष् क्षेत्रीयेष् विषयेष् च पारस्परिकहितान् अभिलक्ष्य अन्ताराष्ट्रियेष् विषयेष् च वार्ता करिष्यन्ति श्रीमान् दवियां अद्य सायं प्रधानमन्त्रिणा नरेन्द्रमोदिना साकम् अपि सम्मेलनं करिष्यति स जलवाय् परिवर्तनस्य विषये सामूहिक चर्चार्थ पर्यावरण वन जलवाय् परितर्वन मन्त्रिणा प्रकाश जावडेकर इत्यमूना सह अपि मेलिष्यति फ्रांस देशीय विदेशमन्त्री रायसीना संवादे अपि प्रतिभागितां करिष्यति अवधेयास्पदम् अस्ति यत् भारत फ्रांस देशयो मध्ये सम्बन्धा अष्टानवत्यधिक नवशतोत्तर एकसहस्राब्दात् एव दृढा सन्ति फ्रांस देशस्य विदेशमन्त्रिण अस्या यात्रानन्तरं द्वयो अपि देशयो मध्ये कोरोनाकालस्य अनन्तरं व्यापारस्य रक्षाया जलवायो प्रवासनस्य गमनागमनस्य शिक्षाया स्वास्थ्यसेवायाश्च क्षेत्रे साहाय्यं दृढसम्बन्धा च भविष्यन्ति रायसीना संवाद प्रधानमन्त्री मोदी अद्य षष्ठतमं रायसीना संवाद इत्याख्यस्य विश्वस्तरीय औगोलिकसंवादस्य उद्घाटनं विधास्यति

आयोजनमिदं चत्र्दिवसामकं भविष्यति

अद्य वार्ताहरान् सम्बोधयन् सः प्रावोचत् यत् परीक्षायां षड्लक्षमिताः छात्रा सम्मिलिता भविष्यन्ति सममेव एकलक्षसंख्याका परीक्षका अपि भविष्यन्ति अनेन परीक्षाकेन्द्राणि कोरोना संक्रमणस्य अतिसंक्रमित क्षेत्ररूपेण सिद्धं भविष्यन्ति अरविन्दकेजरीवाल परामर्श दत्तवान् यत् छात्रान् अग्रिम कक्षाया कृते उत्तीर्ण कर्त् आन्तर्जालीय माध्यमेन परीक्षाया आन्तरिक मूल्यांकनस्य वा सौविध्यं स्वीकर्तव्यम् तेन उक्तं यत् विगते दिने दिल्ल्यां कोरोनाया पञ्चाशत अधिक त्रयोदशसहस्र प्रकरणानि समक्षम् आगतानि सः निवेदितवान् यत् जनै आवश्यककार्यार्थम् एव गृहात् बहि आगच्छेत् सः संसूचितवान् यत् सम्प्रति कोरोनात संक्रमितेष् जनेष् पञ्चषष्टिमिता जना पञ्चचत्वारिंशद् वर्षात् अल्पस्य आयो सन्ति

भारतीय राजस्व सेवाया अधिकारी श्रीमान् चन्द्रा गतवर्षस्य फरवरीमासे निर्वाचनआयोगे आयुक्त रूपेण नियोजित आसीत् स जम्मूकाश्मीरे परिसीम्न कार्यात् सम्बद्धस्य आयोगस्य अपि सदस्य आसीत्

अस्मिन् अवसरे राष्ट्रपतिना रामनाथ कोविन्देन उपराष्ट्रपतिना वेंकैयानायड्ना प्रधानमन्त्रिणा नरेन्द्र मोदिना च जनान् प्रति श्भकामना प्रकटिता जलियांवाला बाग घटना प्रधानमन्त्रिणा नरेन्द्रमोदिना अदय जलियांवाला बाग घटनाया वर्षावसरे हतिंगतेभ्यो जनेभ्यो श्रदधांजलि अर्पिता तेन प्रोक्तं यत् एषां वीरजनानां शौर्येन त्यागेन सर्वे भारतीयजना प्रेरिता भवन्ति ध्यातव्यम् अस्ति यत् इयं घटना ऊनविंशत्यधिक नवशतोत्तर एकसहस्राब्दे जाता आसीत् क्रीडा वार्ताः इण्डियन प्रीमियर लीग इत्यस्य क्रिकेट श्रंखलायां हयः मुम्बई नगरस्थे वानखेडे इति क्रीडाङ्गणे पंजाबकिंग्स इति दलेन राजस्थान रॉयल्स इति दलं चत्र्भि धावनांकैः पराजितम्

इयं प्रतिस्पर्द्धा चेन्नईनगरस्थे एमए चिदम्बरम् क्रीडांगणे भविष्यति